इति प्रधानमन्त्रिणा श्रीनरेन्द्रमसूरणा मोदिना वाराणस्यां कोविड ऽभियाने संलग्नैः कार्यकर्तृभिः सद्यो मसूरितैः जनैश्व सार्धम् अद्य आभासीयप्रणाल्या परिचर्चा विहिता

प्रख्यापिता महामार्या संक्रमितानां स्वस्थताप्रतिशतता समेध्य षण्णवतिदशमलव सप्तअष्ट परिमिता संवृत्ता

यावन्नौषधम् तावन्न शैथिल्यम् इदानीं वार्ता विस्तरेण प्रधानमन्त्री दीक्षांत समारोह प्रधानमिन्त्रणा नरेन्द्रमोदिना अद्य असमराज्यस्य युवभ्य संबोधयता न्यगादीत् यत युवान साहसेन प्रतिबद्धतया च देशाय कार्यं कुर्वन्ता तेन अग्रे उक्तम युवभि अनया महामार्या सह चलायमाने संघर्षे महती भूमिका वोढा असमस्य तेजपुर विश्वविद्यालयस्य समावर्तनसमारोहम् आभासीय माध्यमेन संबोधयता श्रीमोदिना निगिदतम् यत् अस्य विश्वविद्यालयस्य विद्यार्थिन पूर्वोत्तरीय भारतस्य भद्राय कार्यरता स्यू येन हि अस्य क्षेत्रस्य प्रगति उन्नति पथं स्प्रशेत्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 अम्ना राष्ट्रेन महामार्या निराकरणाय अन्यतमा निर्णया निर्णीता पूर्वोत्तरीय राज्याणां विकासाय केन्द्रियसर्वकार प्रतिबद्ध अस्ति यो हि युवभ्य अगणिता नवयोगा योजयिष्यति प्रधानमन्त्रिणा सद्य आस्ट्रेलिया देशं पराभ्य समागतानां क्रीडकान् समुद्धरन् विपरीत परिस्थितौ संघर्षस्य ऐक्य शक्ते च चर्चा कृता सहैव नवीनाया शिक्षानीते वैशिष्टयस्य अपि तेन्नोल्लेख कृत अवसरेऽस्मिन् राज्यप्रमुखेण सह राज्यपाल प्रोफेसर जगदीश मुखी शिक्षामन्त्री रमेश पोखिरयाल निशंक च आसन् मुख्यमन्त्रिणा सर्वानन्दसोनोवालेन तेजपुरविश्वविद्यालयस्य शोधात्मकोन्नते प्रशंसा कृता प्रधानमन्त्री संवाद प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना वाराणस्यां कोविड मसुरणाऽभियाने संलग्नैः कार्यकर्तभिः सद्यो मसुरितैः जनैश्व सार्थम अद्य आभासीय प्रणाल्या परिचर्चा विहिता स्वस्थताकर्मिभि मसुरणाभियानस्य प्रथमपादे एव सुच्यौषधिं स्वीकृत्य निर्णायको पदक्षेप स्थापित तादृशा सर्वेऽपि कार्यकर्तार साधुवादार्हा इति श्रीमोदिना निगदितम् अवसरेऽस्मिन नैके चिकित्सका कार्यकर्तार स्वास्थ्यकर्मिणध आसन तैरपि स्वीयं मसुरणानभवं प्रधानमन्त्रिणा सह वितरन् धन्यवादाश्च विज्ञापिता बंगाल निर्वाचन निर्वाचनायोगेन पश्चिम बंगाले समायोक्ष्यमाणम आगामि विधानसभा निर्वाचनम आलक्ष्य कतिपय निर्णया प्रख्यापिता सन्ति निर्देशानुसारि निर्वाचनावधौ राज्ये सिविक वॉलंटियर इति नागरिक स्वयं सेवका अथ च ग्रीन पृलिस इति विशिष्ट आरक्षिदलं तत्र निर्वाचनप्रक्रियाया बहि स्थास्यन्ति मुख्य निर्वाचन आयुक्त सुनील अरोड़ा अद्य कोलकातायां वार्ताहरसम्मेलनं समाचरति स्म अमना प्रोक्त यत् विगते षण्मासावधौ राज्ये दरापादितानां घटनानां पृथक़ पृथक़ समीक्षणं भविष्यति अत्रांतरे निर्वाचन आयोगस्य पूर्णदलम् राज्यस्य विधि व्यवस्था सन्दर्भे न किमपि वदिष्यति इति प्रोक्तम् अपि च उक्तं यत् राज्ये स्वतंत्रं निष्पक्षं नैतिक हिंसामुक्तं च निर्वाचनं सुनिश्चेतृं तदीयं दलं समेपि आवश्यकान् पदक्रमान् उत्थापयिष्यति पथ्चिमबंगाले यात्रारतं निर्वाचनायोगस्य दलं राज्यस्य उच्चस्तरीयै प्रबन्धन अधिकारिभि सार्थं कोलकातायां मन्त्रणां समाचरति अत्र उपवेशने कोलकाताया प्रमुखसचिव गृहसचिव आरक्षिमहानिदेशक अथ आरक्षि आयुक्त भागं गृह्नन्ति कतिपयकालानन्तरमेव दिल्लीं प्रति प्रस्थानात् प्राक् देशस्य निर्वाचनायुक्त तत्र एकं वार्ताहरसम्मेलनं सम्बोधयिष्यति

इमं सुच्यौषधिं संगृद्य एक प्रशिक्षणात्मक कार्यक्रम बांग्लादेश भूटान मालदीव म्यांमार नेपाल बहरैन ब्राजिल मौरिशस मोरोक्को ओमान श्रीलंकादिभ्य देशोभ्य देशोऽयं संदास्यति कार्यक्रमोऽयं प्रधानमन्त्रिण सागराख्यस्य सेक्यूरिटी एण्ड ग्रोथ फॉर ऑल इन द रीजन इत्यस्य चरिथार्तत्वेन समायोज्यते भारतेन कोविड मसुरणानां क्षेपः सम्प्रति बांग्लादेशाय नेपालाय च प्रेषितः गतदिवसे ढाका नगर्यां भारतीयोच्चायुक्तेन विक्रम दुरई स्वामिना कोविड मसूरणानां विंशति लक्षात्मिका मात्राः स्वदेश पक्षतो बांग्लादेशस्य जनतायै समर्पितः तेनोदीरितं यद् भारतं प्रतिवेशिना बांग्लादेशेन समं स्थितस्य सौहार्दमय सम्बन्धस्य कृते उच्च प्राथम्यं धत्ते प्रत्युत्तरे बांग्लादेशस्य विदेशमन्त्रिणा भारत प्रशासनाय भूरिशोः धन्यवादाः प्रकाशिता कृषि वार्ता केन्द्रप्रशासनस्य कृषकसंघटनानां प्रतिनिधिभिस्समं पुनरद्य नवदिल्यां एकादशस्तरीया परिचर्चा प्रचलति ध्येयं यतु इत पूर्वं समनुष्ठिते वार्तावधौ प्रशासनेन कृषकाणां समक्षं एक प्रस्ताव प्रस्तृत आसीत् यस्मिन् नृतनक्रषिविधेयकानि साधैंकवर्ष यावत् नैव प्रवर्तयिष्यन्ते इति समाश्वासितम आसीत कृषि कृषक कल्याण मंत्री नरेन्द्र सिंह तोमर न्यगादीत् यत् प्रशासनं कृषकसंघटनानां प्रतिनिधयथ्ड कृषक आंदोलन संबद्धं सकलमपि प्रकरणमवलम्ब्य चर्चां कर्तु समर्हन्ति येन सम्चितं समाधानं प्राप्न्यात् यद्यपि गतदिने विहितं उपवेशनानन्तरं संयुक्त कृषक मोर्चा समुद्घष्टवान् यत् कृषका स्वीयां अभियाचनां नैव त्यक्ष्यन्ति संघटनेन एतदपि प्रोक्तमासीत् यत यावत् नृतनानि कृषि विधेयकानि नैव निराकरिष्यति प्रशासनं तावतु न कस्मिन्नपि उपस्थापिते प्रस्तावे वयं विचारं करिष्याम